जनरल नरवणे अष्टविंशतिम सेनाध्यक्ष चित

उत्तर भारते शैत्य प्रकोप प्रवर्तते

थलसेना वायुसेना नौसेनया मध्ये भद्रतम समन्वये बिपिन रावत महोदयः ध्यानं प्रदास्यति जनरल रावत अद्य थलसेनाध्यक्ष पदात् सेवानिवृत्त जात असौ पञ्च षष्टि वर्षपर्यन्त सेवां प्रदास्यति इत प्राक् जनरल बिपिन रावतेन सैन्य कार्मिकेभ्य तेषां परिवारेभ्य सेनाध्यक्षत्वेन त्रि वर्ष पूर्त्तये सहयोगाय च धन्यवाद ज्ञापित

अमेरिका देशेन जनरल रावताय भारतस्य प्रथम चीफ ऑफ डिफ्रेंस स्टॉफ नियुक्ते श्भाशया प्रदत्ता जनरल मनोज मुकंद नरवणे अद्य अष्टविंशति तमं सेनाध्यक्ष चितोऽस्ति जम्मू कश्मीरम् जम्मू कश्मीरे ह्य रात्रौ चतु दशमलव सप्त दशमलव पञ्च मित तीव्रता युत भूकम्प अनुभूत भूकम्पोऽयं वार चतुर्थं अनुभूत कस्यापि जनधनक्षते सूचना नाधिगतास्ति

केरल उत्तर्यप्रदेश विधानसभा उत्तस्प्रदेश विधानसभया अद्य एक प्रस्ताव पारित अथ च लोकसभायां राज्य विधानसभायां च अनुसूचित जाते अनुसूचित जनजाते जनानां कृते रक्षण अवधि दश वर्षाय वर्धित

केरल पाक्सो केरल प्रशासनेन बाल यौन अपराध संरक्षण पाक्सो इति अधिनियम सम्बद्ध प्रकरणेभ्य अष्ट विंशति नूतन द्रत पथ न्यायालयानां स्थापन देशा प्रसारिता केन्द्रीय विधि मन्त्रालयेन सन्दर्भेंऽस्मिन् सहमति अपि प्रकटिता

एतेषु बहव वैदेशिका अपि समाविष्टा सन्ति

विमान सेवा पूर्णतया स्थगिता सन्ति शैत्यम् उत्तरभारतं शैत्य प्रकोपेन प्रभावितं वर्तते पञ्जाब हरियाणापि शैत्यप्रकोपे वर्तेते तत्रत्यो न्यूनतम तापमान द्वि दशमलव त्रि डिग्री सेल्सियस कलित अस्मदीय वार्ताहरेण विज्ञापितं यत् हिसार अंबाला रोहतक अमृतसर लुधियाना समेत्य बहुषु स्थलेषु शैत्य प्रकोप वर्तते नवदिल्ल्यामपि शैत्यं वर्धते ओडिशा एकादश पर्यन्त प्रचलिष्यमाणा सुप्रसिद्ध धानु जात्रा अद्य पश्चिम ओडिशाया बारगढे प्रारप्स्यति

नगालैण्ड अशेषे नागालैण्डे संशस्त्र बल विशेषाधिकार अधिनियमस्य अफ़स्पा इत्यस्य अवधि षड् मासार्थं विवर्धित

राज्यम् अशान्त क्षेत्रं घोषितम्